जम्मूकश्मीरस्य राज्यपालेन सत्यपालमलिकेन ईद पर्वण सज्जाताया अथ च श्रीनगरस्य चिकित्सालयेष् स्वास्थ्य सौविध्यानां समीक्षा कृता मलिकेनोक्तं यत् प्रशासनं ईद पर्वण सज्जतायै जनेभ्यो सौविध्यं च प्रापयित्ं प्रयासरतं वर्तते अम्ना ईदपर्व भयं विनैव शान्तिपूर्णरीत्या आमानयित्ं जना अध्यर्थिता सोनिया कांग्रेसदलस्य कार्यसमितेरूपवेशने हय सोनियागांधी दलस्य अन्तरिम अध्यक्षा प्रचिता राहलगांन्धिनः त्यागपत्रमपि कार्यसमित्या स्वीकृतम् कांग्रेस दलस्य प्रवक्ता रणदीपस्रजेवाला अवादीत् यत् कार्यसमिते दवितीयपवेशने सर्वसम्मत्या एतद विषय समबदध प्रस्तावं अनुमतम

आकाशवाण्या टॉक शो कार्यक्रमे खेल य्व कल्याण समित्या सदस्य सचिव लख्याकोनवार अवादीत् यत् अस्मिन् महा आयोजने दश सहस्र युवान विभिन्न प्रतिस्पर्धासु सहभागं करिष्यन्ति श्रीकोनवार अवादीत् यत् क्रीडानां प्रोत्साहनार्थ असमप्रशासनं ग्रामीणस्तरे द्वाविंशतिः सहस्र क्रीडांगणानां निर्माणं करिष्यति तेन प्रोक्तं यत् अस्मिन् एव वर्षे पञ्चशतम् क्रीडांगणानां उद्घाटनं भविष्यति सूर्यप्रकाश प्रसार भारतत्या अध्यक्ष डॉ॰ सूर्यप्रकाश अवादीत् यत् आकाशवाणी द्रदर्शनं च भारतीय संस्कृत्या शास्त्रीयसंगीतस्य च संरक्षणं क्रुत नवदिल्ल्यां आयोजिते नवदशाधिकद्विसहस्रतमवर्षस्य आयोजिते ओडिशा प्रस्कार समारोहं संबोधयन् डॉ॰ प्रकाश आवादीत् यत् संसदा भारतस्य विविधताया प्रचीनताया संरक्षणार्थं प्रसारभारतीं प्रति उत्तरदायित्वं प्रदत्तम् तेन प्रोक्तम् यत् अन्य प्रसारण समवाया मनोरजक कार्यक्रमाणां प्रसारणं क्वन्ति परं द्रदर्शनं आकाशवाणी च भारतीय संस्कृत्या प्रोन्नत्यै प्रतिबद्धे स्त झारखण्ड झारखण्डे हय हजारीबागजनपदे स्रक्षाबलै सह संजाते संघर्षे एक माओवादी व्यापादित

क्रिकेट भारत वैस्टइण्डीज दलयोर्मध्ये अन्वर्तमानाया एकदिवसीयक्रिकेट स्पर्धा मालिकाया द्वितीया स्पर्धा अद्य क्रीडिष्यते भारतीयसमन्सारेण स्पर्धेयं सायं सप्तवादने प्रारब्धा भविष्यति